निगदितं च यत् राज्यात् बहि निवसदभ्य ईद पर्वणि गृहमाग् सर्वविधं साहाय्यं प्रदास्यते गतसायं राष्ट्र संबोधयता प्रधानमन्त्रिणा प्रोक्तं यत् सप्तत्यधिक त्रिशत संख्याकानुच्छेदस्य निरसनात् जम्मू कश्मीर लद्दाखयो निवासिनां कृते एकस्य अभिनवस्य युगस्य आरम्भोऽजायत तेन उदीरितं यत दशकेभ्य जम्मुकश्मीर परिवारवाद पोषित प्रशासनात् अत्रत्या युवान वृत्ते मुख्यधारायाश्व पूर्णतो विच्छिन्ना राष्ट्ररूपेण अस्माकं देशेन एक ऐतिहासिको निर्णय विहित श्रीमता मोदिना निगदितं यत् नूतन व्यवस्थायां केन्द्र शासनस्य ञि प्राथमिकता भविष्यति यत् देशस्य अन्य भागानां कर्मकरारक्षिबलवत् जम्मूकश्मीरस्य कर्मकरा आरक्षिणश्व समानावसरा प्राप्नुयुरिति जम्मुकश्मीरस्थिति जम्मूकश्मीराय केन्द्रस्य नूतनराजनीतिक व्यवस्थाया प्रवर्तनस्य पंचमे दिने स्थिति समस्या वर्तते जम्मू कठ्आ साम्बा जनपदेष् विहित प्रतिबन्धेष् नैयून्यं कृते सति शिक्षणसंस्थानि पुनरारब्धानि लद्दाखे अपि विद्यालया कार्यालया अपणानि च पुनरुद्वाटिता राज्यपालेन सत्यपालमलिकेन अन्दिनम् अधिकारिभि सह सम्भाषणं विधाय स्थिते परिज्ञानं विधीयते कश्मीरस्य उपायुक्तेन जनपद मुख्यालया निर्दिष्टा यत् ते जम्मूकश्मीरात् बहि वास्तव्यानाम् बालानाम् अभिभावकेभ्य संवादाय दरभाष सौविध्यं संचालयेयू

अम्नोक्त यत् लद्दाखाय केन्द्र शासित प्रदेशत्वेनान्मति प्रदानस्य असौ समर्थन करोति प्रशासनस्य निर्णयस्य नैके सकारात्मकपक्षा विद्यन्ते

दलस्य महासचिव भूपेन्द्रयादव महाराष्ट्रस्य केन्द्रीयमन्त्री नरेन्द्रतोमर हरियाणाया दलस्य महासचिव ओमप्रकाशमाथुर झारखण्डस्य केन्द्रीयमन्त्री प्रकाश जावडेकरश्च दिल्ल्या निर्वाचन प्रभारिणो भविष्यन्ति अपि च बिहारस्य मन्त्री नन्दकिशोरयादव झारखण्डस्य सह प्रभारी केन्द्रीयमन्त्री हरदीपसिंहप्री अथ च नित्यानन्दरॉय दिल्ल्या सह प्रभारिणौ भविष्यन्ति राज्यपाला अमितशाह तमिलनाड़ आन्ध्रप्रदेश त्रिपुरा चेति राज्यत्रयस्य राज्यपाला अद्य गृहमन्त्रिणम् अमितशाहम् अमिलन् राज्यत्रयस्य राज्यपालै पृथक् पृथक् रूपेण राज्यसम्बद्धा विषया गृहमन्त्रिणा साकं परिचर्चिता

गृहराज्यमन्त्री नित्यानन्दरॉय अद्य नवदिल्ल्याम् उच्चस्तरीयोपवेशनम् अकारयत् उपवेशने केरल कर्णाटक ग्जरात महाराष्ट्र राज्यायां स्थिति समीक्षिता